संसद सदनद्वयेन अद्य राष्ट्रपते अभिभाषणे धन्यवादप्रस्ताव चर्चित

विधिमन्त्रिणा रवि शंकर प्रसादेन आधार अन्यत च विधि संशोधन विधेयकम नवदशोत्तर द्विसहस्रम् अपि प्रस्त्तम विधेयके नियमोल्लंघनस्य दण्डोपि प्रस्तावि गृह राज्यमन्त्रिणा जी किशनरेड़िडना सदने जम्म कश्मीर आरक्षण संशोधन विधेयकं नवदशोत्तर द्विसहम्रं प्रस्तुतम् संसद संसद सदनद्वयेन अद्य राष्ट्रपते अभिभाषणे धन्यवादप्रस्ताव प्रारब्ध राष्ट्रपतिना रामनाथकोविंदेन जून विंश्यां संसद सदनद्वयं संयुक्तरूपेण संबोधितमासीत् केन्द्रीय मंत्री प्रतापचन्द्रसारंगी लोकसभायां चर्चां प्रारब्धवान तेन प्रोक्तं यत् देश मोदीप्रशासनं विश्वसन् मतदानं प्रायच्छत् देशस्य विकासे केन्द्रं राज्यं च मिलित्वा कार्यं करोति

अद्य लोकसभायां प्रक प्रश्नानां उत्तरं प्रयच्छन् शिला तैल प्राकृतिक ईन्धन मन्त्री धर्मेन्द्र प्रधानश्च उक्तवान यत् चतुर्दशोत्तर द्विसहस्राव्द पर्यन्तं षट्षष्टि जनपदेषु एव अस्य उपलब्धि आसीत्

न्यायमूर्ति संजीव खन्ना बी आर गवई स्वित्यस्य पीठमपि बिहार प्रशासनं राज्ये उपयुक्तानां चिकित्सा सुविधानां पोषण प्रदातुमुक्तवन्तौ

अरूणाचल प्रदेशे ए एन द्वात्रिशत् विमानस्य द्र्घटनया तदारूढा त्रयोदश जना मृता गुजरात उतर मध्य गुजराते अधिकांशेषु क्षेत्रेषु गत चतुर्विंशतिहोरासु मध्यमात् तीव्रा वृष्टि अभूत् प्रशासनिकै सूत्रे सूचितं यत एकोनविंशाति जनपदानां षट्षाष्टि क्षेत्रेष् मध्यमात् तीव्रा वृष्टि जाता क्रिकेट विश्व चषक क्रिकेट् स्पर्धायां साउथम्पटने अद्य बांग्लादेश अफगानिस्तानयो स्पर्धा भवति